भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

प्रधानमंत्रीनीति योग प्रधानमन्त्री प्रावोचत् यत् प्रतिस्पर्धी सहकारी संघवादस्य भावना न केवलं राज्यानां अपित् जनपपदानां मध्येऽपि भवितव्या

स न्यगादीत् यत् चत्र्दशाधिक द्विसहस्राब्दस्य अनन्तरं ग्रामीणनागरक्षेत्रेष् चत्वारिशत् अधिक द्विकोटिसंख्यकानि भवनानि निर्मितानि जल जीवनाभियानेन ग्रामीणक्षेत्रेष् सार्धत्रिकोटि संख्यकेभ्यो जनेभ्यो नलिकाद्वारा जलप्रापिता

तेन कोरोना महामार्या काले राज्याणां केन्द्रै सह विहितानि कार्याणि प्रशंसितानि यत् सहकारी संघवादस्य उत्तम प्रतिमानोऽस्ति प्रधानमन्त्रिणा कृष्यृत्पादानां भण्डार प्रसंस्करणयो अपि ध्यानम् कृष्टम्

यात्राया प्रारम्भे असमराज्यस्य धेमाजी जनपदस्य सिलापत्थरस्थाने समायोजिष्यमाणे कार्यक्रमे तैलवातिक्षेत्रसम्बद्धा महत्वपूर्णा परियोजना देशाय समर्पयिष्यति

पुन पश्चिमवंगराज्यस्य हुगलीस्थाने नैकाषां रेलपरियोजनानाम् उद्घाटनं विधास्यति भारत चीन कमांडर वार्ता भारतचीनदेशर्योमध्ये वास्तविकनियन्त्रणरेखाया चीनपक्षस्थे मोलदो स्थाने प्रमुखसेनानीस्तरीय दशमचक्रीयम् उपवेशनं अद्य प्रात प्रारब्धम् ध्यातव्यमस्ति यत् पैंगोंग हृदस्य उत्तर दक्षिणतटे सैन्यानां परावृत्ते कार्यं सम्पन्नमस्ति